उत्तरप्र शारक्षिबलेन सबलं व्याहृतं यत् ऊनविंशाधिक द्विसहस्रतम वर्षीयं नागरिकता संशोधनाधिनियमम् अभिलक्ष्य लखनऊ नगरे शिसम्बर मासस्य ऊनविंशे शिनाड़के विरोध प्रशर्शनावसरे ़्रा न्न हिंस्र घटनानां प्रम्खा षड़्यन्त्रकारिण लखनऊ आरक्षिभि निगृहीता सन्ति अदय राष्ट्रिय उ भोक्त िवस वर्तते उ भोक्त्रान् ोलनस्य महत्व ख्या नम् अधिकाराणाम् उत्तर ायित्वानाञ्च विषये उ भोक्तृष् जागरूकतोत ा नम् अस्य प्रम्खोदोश्येष् अन्यतमे स्तः

केन्द्रीयमन्त्रिमण्डलम केन्द्रीयमन्त्रिमण्डलेन अदय रक्षाकर्मिप्रमुख सर्जनाय विनिर्णीतमु

अस्य वेतनमप्रि सैन्यप्रमुखवेतनसहशं भविता

उत्तरप्रदेशहिंसा उत्तरप्र शारक्षिबलेन सबलं व्याहृतं यत् ऊनविंशाधिक दविसहस्रतम वर्षीयं नागरिकता संशोधनाधिनियमम् अभिलक्ष्य लखनऊ नगरे शिसम्बर मासस्य ऊनविंशे शिनाड़के विरोध प्र र्शनावसरे ़्राधन्न हिंस्र घटनानां प्रमुखा त्रय षड्यन्त्रकारिण लखनऊ आरक्षिभि निग्हीता सन्ति

साम्प्रतं राज्ये स्थिति सामान्या वर्तते

अत्रान्तरे मेरठं गच्छन् कांग्रेस नेता राहल गान्ध समवरुदधः

उ भोक्त्रान् ोलनस्य महत्व ख्या नम् अधिकाराणाम् उत्तर ायित्वानाञ्च विषये उ भोक्तृष् जागरूकतोत ा नम् अस्य प्रमुखोद श्येष् अन्यतमे स्तः

भारत वेस्टइंडाजयोर्मध्ये सद्यः समायोजितास् स्पर्धास् आभ्यां क्रिकेट ध्रन्धराभ्याम् उत्तम प्र र्शनं विधाय स्थानमेतद अधिगतमस्ति